रक्षामन्त्रिणा राजनाथसिंहेन निर्णस्यास्य स्वागतं प्रक्वन् निगदितं यत् अनेन राष्ट्रस्य राजस्वाभिवर्धने सहायतां मिलिष्यति नवदेहल्यां केन्द्रियसर्वकारेण सह कृषिसंघानां मध्ये जायमाना षड्तमा उपवेशनात्मिकी वार्ता सम्प्रत्यपि निष्कर्षं प्रतीक्षते

काश्मीरप्रान्तस्य बाद्यंश भागे होकरसर जनपदे सुरक्षाबलै साकं जायमाने संघर्षे त्रय आतंकवादिन मृत्युम् उपगता सर्वकारेण नूतन संक्रमणम् अभिलक्ष्य ब्रिटेन देशेन सह वर्षान्तदिवसं यावत् अस्थायीरुपेण स्थगिता वाय्मार्गीया यातायातव्यवस्था परिवर्ध्य आगामी खिष्टाब्दस्य प्रथममासस्य सप्तमदिनांक यावत् कृतम् देशेन कोरोनामहामारीं प्रति नैरन्तर्यम् साफल्यं अधिगतम् कोरोणा महामारीत स्वस्थीभूतानां मिति पञ्चनवति दशमलव नव नव परिमिता संवृत्ता

प्रधानमन्त्रिण आध्यक्ष्ये मन्त्रिमण्डलेन प्रक्रियैषा द्रतगत्या कार्यान्वयाय समित्यैका गठितव्येति अनुमता रक्षामन्त्रिणा राजनाथसिंहेन निर्णस्यास्य स्वागतं प्रकुर्वन् निगदितं यत् अनेन राष्ट्रस्य राजस्वाभिवधने भारतं आत्मनिर्भरताया प्रगतिपथौ नयने च सहायतां मिलिष्यति आत्मनिर्भरभारतत्वेन देशोऽयं विभिन्नेष् शस्वास्वादि निर्माण क्षेत्रेष् उन्नतिम् अन्गच्छति आकाशप्रक्षेपास्रोऽयं षण्णवति प्रतिशतं स्वदेशीरित्या भारतेनैव रचितम् पञ्चविंशति किलोमीटरात्मकं क्षेत्रमभिलक्ष्य वायौ प्रहारे सक्षम अयं प्रक्षेपास्त्र डीआरडीओ इत्यनया सामरिकशोधसंस्थया निर्मित अस्ति कृषि वार्ता नवदेहल्यां केन्द्रियसर्वकारेण सह कृषिसंघानां मध्ये जायमाना षड्तमा उपवेशनात्मिकी वार्ता सम्प्रत्यपि निष्कर्षं प्रतीक्षते सर्वकारेण पत्रै आवाहितानां चत्वारिशत् संख्यकानां कृषिसंघानां पारस्परिकी वार्ता प्रचलन्नस्ति विधित्रयमुपलक्ष्य गतिरोधमपाकत्ी प्रयतमान केन्द्रियसर्वकार न्यूनतमसमर्थन मूल्यमु वायुगुणवत्तया विधिना साकं वैद्युत विषयिकीं चर्चाम् अपि करिष्यति यस्मिन् कृषिमन्त्री नरेन्द्रसिंहतोमर श्रीपीयूषगोयल श्रीसोमप्रकाशश्च कृषिनेतृभि साधं भाषमाणा सन्ति राष्ट्रपति डिजिटल पुरस्कार दृश्यश्रव्य माध्यमेन समायोजिते डिजिटल इंडिया पुरस्कार विशत्योत्तर विशति नामके कार्यक्रमे राष्ट्रपतिना श्रीमत् कोविन्दवर्येण निगदितं यत् सर्वेऽपि देशवासिन डिजिटल माध्यमेन विनिमयाय तत्परा स्यु इत्यदर्थं च सर्वकार नवनवाचारै प्रयास कुर्यात् तेन अप्रे उक्तं यत् अद्यापि जनसंख्याया बृहदंश अनया सेवया विच्छिन्न अस्ति राष्ट्रपतिना भणितं यत् सूचनाप्रौद्योगिकीद्वारा सम्प्राप्तानि नवीनसमाधानानि सुद्रदेशस्थेष्वपि जनेषु सामाजिकपरिवर्तनाय आर्थिकोन्नत्यै च प्रयुक्तव्यानि अग्रे तेन निगदितं यत् प्रत्येकस्य नागरिकस्य सुरक्षाहितं च ध्यात्वा कर्गदसंपर्करहितया प्रक्रियया सार्वकारीयकार्यालयेषु कार्यनिष्पादनाय प्रयासो विधेय आभासीय विशेषज्ञानां भूमिकाया प्रशसां प्रकुर्वन् श्रीकोविंदेन भणितं यत् तै विशेषज्ञ कथं राष्ट्र महामार्योत्पन्नेन संकटेन रक्षितव्य इति दिग्दर्शितम् तेन उक्तं आरोग्य सेत् इत्यादिनापि संकटात् पारगमने स्वभूमिका वोढा भवन्त भवत्यश्च संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत श्रृण्वन्ति

काश्मीर संघर्ष काश्मीस्पान्तस्य बाह्यंश भागे होकरसर जनपदे सुरक्षाबलै साकं जायमाने संघर्षे त्रय आतंकवादिन मृत्युम् उपगता आरक्षकै आकाशवाण्या वार्ताहरं निगदितं यत् अद्य प्रात काले आततायिन मृत्युम् प्राप्ता परञ्च सम्प्रत्यपि आततायिनां परिचयं न प्राप्तम् सुरक्षाबलै द्य सांध्यकाले होकरसरजनपदे प्राप्त सूचनानन्तरं अन्वेषणस्य प्रक्रियां प्रारब्धम् उ हानिम् अपाकतुं रात्रौ या अन्वेषण प्रक्रिया स्थगिता सम्प्रति प्रक्रियेयं प्रचलति इति अन्तिमा सूचना प्राप्ता प्री ब्रिटेन सर्वकोरण नूतन संक्रमणम् अभिलक्ष्य ब्रिटेन देशेन सह वर्षान्तदिवसं यावत् अस्थायीरुपेण स्थगिता वायुमार्गीया यातायातव्यवस्था परिवर्ध्य आगामी ख़िष्टाब्दस्य प्रथम मासस्य सप्तमदिनांक यावत् कृतम् नागरिकोड्डयन मन्त्रिणा पुरी हरदीपेन निगदितं यत् अस्या अवधे अनन्तरमपि कठोरनियमै सह व्यवस्थेयं पुन चालिता भविष्यति

निर्णयस्यास्य अनुशंसा भारतसर्वकारस्य स्वास्थ्यमन्त्रालयेन विहितमासीत् केन्द्रिय स्वास्थ्यसचिवेन पत्रद्वारा सर्वेडपि राज्या सुनिर्दिष्टा यत् सर्वा घटना सूक्ष्मतया द्रष्टव्या य कोऽपि संक्रमण संवाहक भवित्मर्हति स सम्यक्तया वारयितव्य विषयेऽस्मिन् सचिवेन अप्रे लिखितं यत् नूतनख़िष्टाव्दोत्सव अपि असुरक्षितसम्मर्दरहित भवेदिति निश्चेतव्य

त्रयाणां जनानां बेंगलुरुप्रान्तस्य निमहंसमध्ये जनइयस्य हैदराबादस्य सेंटर फॉर सेलुलर पेड मॉलिक्युलर बायोलॉजी विभागे अथ च क्रिस्य जनस्य पुणे प्रान्तस्य राष्ट्रिय विषाण् विज्ञान संस्थाने उपचार क्रियमाण अस्ति

स्वास्थ्यमन्त्रालयस्य अधिकारिणा प्रतिपादितं यत् स्थितौ प्रशासनस्य महत्वपूर्णा दृष्टि विद्यते अवसरेऽस्मिन् तेन इदमपि उक्तम् यत् राज्यानि संक्रमणस्य परीक्षणाय प्रयोगशालासु किस्यां प्रयोगशालायां नियमितरुपेण प्रेषणाय परामर्शितानि इति

कोरोणा महामारीत स्वस्थीभूतानां मिति पञ्चनवति दशमलव नव नव परिमिता संवृत्ता विगते चतुर्विंशति होरावधौ षड्विंशतिसहस्रम् जना स्वस्था अभूवन् स्वास्थ्यमन्त्रालयेन निगदितं यत् अद्यावधि प्रायश चत्स्रिंशत्सहस्राधिक अष्टनवतिलक्षमिता जना स्वस्थीभूता इदानीं देशे द्रिषष्टिस्वहस्राधिक द्रिलक्षमिता संक्रमिता जना उपचाराधीना वर्तन्ते विगते अहोरात्रे षडाशीत्याधिकद्विशतम् संक्रमितानां मृत्यु सब्जातास्ति देशेन कोविड परीक्षणेऽपि क्रिा उपलब्धि प्राप्ता यतो हि गत चतुर्विशतिहोरासु केवलं विशतिसहसाधिकैकादशलक्षमितानां रोगिणां परीक्षणं संजातम् भारतीय आयुर्विज्ञान अनुसंधान परिषदनुसारं अद्यावधि प्रायश नवलक्षाधिकसप्तदशकोटीनां जनानां परीक्षणम् अभवत् प्रधानमन्त्री नेताजीसुभाष प्रधानमन्त्रिणा नरेन्द्रमोदिना नेताजीसुभाषचन्द्रवोसवर्यद्वारा पोर्टब्लेयर नामके स्थाने भारतीय ध्वजोत्तोलनस्य पञ्चसप्ततिममं वर्षम् अनुस्मरन् स्वट्वीट सन्देशे निगदितं यत् त्रिचत्वार्रिशदधिकैकोनविंशतितमस्य खिष्टाब्दस्य दिसम्बरमासस्य त्रिंशतालिका प्रत्येकस्य भारतीयस्य मानसपटले कि ऐतिहासिक दिनं वर्तते यदा शौर्यशालिना सुभाषवर्येण कि गौरवात्मिकी घटना विरचिता